अद्य भारत संविधानस्य प्रमुख रचनाकारस्य डॉक्टर भीमराव अम्बेडकरस्य त्रिशदधिक एक शततमी जन्मजयन्ती वर्तते

एतदर्थं निवेद्यते यत् असावधानताया आचरणं मा व्यवहरन्त्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

इयं वार्ता दृश्य श्रव्य परान्तर्जालीय माध्यमेन भविष्यति गत सप्ताहे प्रधानमन्त्रिणा कोविड स्थितिं समीक्षित् मुख्यमंत्रिभि साधं वार्ता कृता आसीत् वर्धमानानि कोरोना प्रकरणानि दृष्ट्वा मोदिना उक्त यत् महामार्य नियन्त्रणाय सुक्ष्म नियन्त्रण केन्द्रेष् आवश्यकता वर्तते

अनेन सामाजिक भेदभावं समापयित्ं बहनि कार्याणि कृतानि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

रमजान मासस्य अद्य प्रथम दिवस वर्तते पीएम रायसप्रीडायलॉग प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्य दृश्य श्रव्य परान्तर्जालीय माध्यमेन षष्ठ तमस्य रायसेन डायलॉग इत्याख्यस्य चतुर दिवसीय विश्वस्तरीय भौगोलिक संवादस्य उद्घाटन कृतमु

केन्द्रीय स्वास्थ्य मन्त्रालयस्य सचिवेन राजेश भृषणेन राज्यानि याचितानि यत् तै विभिन्नापूर्ति शुंखलास् सुच्यौषधस्य उपलब्धताया समीक्षा करणीया आवश्यकतानग्ण आपूर्ते उचित व्यवस्था अपि करणीया केन्द्रप्रशासनेन अधना पर्यन्त राज्येभ्य केन्द्रशासित प्रदेशेभ्यश्च त्रयोदश कोट्यधिकानि सुच्यौषधानि सुलभायितानि स्वास्थ्य सचिवेन प्रवर्धित कोरोना संक्रमण चिन्ता प्रकटयिता उद्घष्ट यत् त्रिपञ्चाशत् केन्द्रीयदलानि कोरोनासंक्रान्ता क्षेत्रेष प्रेषितानि एतानि दलानि संक्रमणं अवरोद्धम राज्यानां साहाय्यं कुर्वन्ति

इदं मतदानं षट् जनपदानां पञ्च चत्वारिंशत् निर्वाचन क्षेत्रेष् भविष्यति

केन्द्रीय गृहमन्त्री भाजपा दलस्य च वरिष्ठ नेता अमितशाह पश्चिम बंगाले जनसभात्रयं सम्बोधयत एकं मार्गप्रदर्शन च अकरोत् असौ आक्षिप्तवान् यत् सवतंत्रता प्राप्त्यनन्तर कांप्रेस कम्यूनिस्ट टीएमसी दलानि दार्जिलिङ्ग क्षेत्रस्य विकासकार्याणि अवरोधयन्ति अस्मिननेव क्रमे भाजपा दलस्य अध्यक्ष जगत्प्रकाश नड़डा नदिया वर्धमान कटवा चेति क्षेत्रेष् मार्गप्रदर्शनं क्रतवान्